अस्योद्देशं क्षेत्रेष् एतेष् आर्थिक गतिविधि कौशल विकास आधारभूत सुविधानां विवर्धनम् अस्ति राष्ट्रपतिना डोनाल्ड ट्रम्पेणोक्तं यत् असौ प्रधानमन्त्रिणः नरेन्द्रमोदिनः व्यक्तित्वात् प्रभावितो वर्तते आगामि यात्रायां तेन साकं विस्तृत चर्चा विधास्यते केन्द्रेण मद्रासोच्चनायायालयं कथितं यत् राजीवगान्धी हत्या प्रकरणे संलिप्त दोषिणः केन्द्र प्रशासनस्य सहमति विना विमक्ताः न भविष्यन्ति रर्बन मिशनम् श्यामाप्रसादमुखर्जी रर्बन मिशन अर्थात् ग्राम नगरीकरण अभियानेन अद्य चतुर्वर्ष प्रपूरितम् प्रधानमन्त्रिणा मिशनास्यास्य श्भारम्भः षोडशोत्तर द्विसहस्रतमे वर्षे फरवरी एकविंशे छत्तीसगढ़े राजनांदगांव जनपदे विहितमासीत् अस्योद्देश्यं राज्येष् केन्द्रशासितप्रदेशेष् च सर्वांगीण विकास मार्गाणाम् उद्घाटनम् वर्तते श्यामा प्रसाद म्खर्जी नेशनल रर्बन मिशनान्तर्गतं त्रि शत प्रामीण समूहाः विकसिताः भविष्यन्ति ग्रामीण विकास सचिवेन राजेश भूषणेन आकाशवाणीतः विशिष्टे सम्भाषणे मिशनस्योदेश्याः चर्चिताः ट्रम्प मोदी अमेरिकीय राष्ट्रपतिना डोनाल्ड ट्रम्पेणोक्तं यत् असौ प्रधानमन्त्रिणः नरेन्द्रमोदिनः व्यक्तित्वात् प्रभावितो वर्तते तेनोक्तं यत् असौ भारत यात्रावधौ तेन साकं व्यापार विषये चर्चिष्यते उभयोः मध्ये रक्षा सुरक्षा व्यापारं समेत्य विभिन्न द्विपाक्षिक प्रकरणानि चर्चिष्यन्ते इत्याशास्यते देशयोर्मध्ये वस्तु सेवानां पारस्परिक व्यापारः विश्वेन समं अमेरिकायाः व्यापारस्य त्रि प्रतिशतं विद्यते ट्रम्प अहमदाबाद अहमदाबादे मोटेरायां सरदार पटेल प्रांगणं सोमवासरे नमस्ते ट्रम्प इत्यस्मिन् कार्यक्रमे अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रधानमन्त्रिणः नेत्द्रमोदिनः च स्वागतं व्याहरिष्यति प्रांगणोऽयं विश्वस्य बृहत्तमः प्रांगणो विद्यते लक्षाधिकजनानां क्षमतायुतः क्रिकेट प्रागणोऽयं विद्यते एषः प्रथमः प्रांगणो विद्यते यः भारतीय हरित निर्माण परिषदः आईजीवीसी एतस्मात् स्वर्ण हरित प्रमाण पत्र सम्मानितो वर्तते मद्रासोच्चन्यायालयः केन्द्रेण मद्रासोच्चनायायालये स्पष्टीकृतं यत् राजीवगांधी हत्याप्रकरणे संलिप्ताः दोषिणः अनुमतिं विना विमुक्ताः न भविष्यन्ति ह्यः याचिकायाः श्रवणकाले आरोपिजनेन स्वीय प्रत्याभूतिः अभ्याचना विहितासीत् अपर महाधिवक्त्रा जी राजगोपालेनोक्त यत् केन्द्रस्यानमति विना राज्य मन्त्रिमण्डलस्य अन्शंसायाः अर्थं नास्ति

राजनाथ रक्षामन्त्रिणा राजनाथ सिंहेनाद्य दिल्ल्यां सद्धि शिविरे थलसेना भवनस्य आधारशिला संस्थापिता ऊनत्रिंशत् एकड़ भूमो निर्मितः नूतन सेना मुख्यालयः मानेकशा केन्द्र निकषा निर्मास्यति अत्र षड् सहस्र संख्ञ कार्मिकाणां निवास व्यवस्था भविष्यति

एतेषु सम्मेलनेषु आतंकिनां कृते धन साहाय्यमपाकर्तुं पाकिस्तान विहितोपायाः समीक्षिताः

मन की बात प्रधानमन्त्री नरेन्द्रमोदी आकाशवाणी तः रविवासरे एकादश वादने मन की बात कार्यक्रमे स्वीयोद्राराः प्रकटयिष्यति